भारत जापान देशाभ्यां भारत प्रशान्त क्षेत्रे सुरक्षा स्थिति सविस्तर प्नरीक्षिता विदेशमन्त्री एसजयशंकर गतिदवसे माले नगर्यां मालदीव्स देशीयाया संसदोऽध्यक्षं मोहम्मद नाशीदम् अमिलत्

सः तत्राद्य समारभमाणे पूर्वीयार्थिक मञ्चस्य पञ्चमे शिखरोप वेशने भागमावक्ष्यति सहैव श्रीमोदी रशिया राष्ट्रपतिना व्लादिमिर पृतिनेन सार्धं भारत रशिया देशयो विंश्यां वार्षिक विमर्श गोष्ठ्यामपि समुप स्थास्यते स्वीय शृंखलित ट्वीट् सन्देशेष् प्रधानमन्त्रिणा प्रोदीरितं यदसौ श्रीप्तिनेन समं विभिन्नान् क्षेत्रीय वैश्विक विषयान् अधिकृत्य चर्चामाचरितुं समुत्सुकोऽस्ति

समीक्षणेऽस्मिन् दक्षिण चीन सागरे साम्प्रतिका गति विधयोऽपि सुतरां समालोचिता स्वीय टोक्यो यात्राया क्रमे प्रतिरक्षा मन्त्री श्रीराजनाथ सिंह स्वीय समकक्षेण ताकेशी इवाया वर्येण सार्थं व्यापक सम्भाषणं व्यदधात् पश्चात् प्रसारिते संयुक्त वक्तव्ये नेतृद्वयेन देशद्वयस्य वार्षिकात् शिखरोप वेशनात् पूर्वः विदेश प्रतिरक्षा मन्त्रालययोः स्तरे विमर्शान्ष्ठानाय विहितो निर्णयः पुष्टीकृत मालदिव्स् जयशंकर विदेशमन्त्री एसजयशंकर गतिदवसे माले नगर्यां मालदीव्स देशीयाया संसदोऽध्यक्षं मोहम्मद नाशीदम् अमिलत् उभौ नेतारौ देशद्वयस्य समान लक्ष्याणि अभिलक्ष्य सविस्तरं सम्भाषणमन्ष्ठितवन्तौ अत्रेद ध्यातव्यमस्ति यत् सम्प्रति श्रीजयशंकर तत्र देशे हिन्द महासागरीय संमेलनस्य चतुर्थे संस्करणे संनिधातृं यात्रारतो विद्यते

देशद्रयस्य प्रतिरक्षा सहभागिता सन्धे अन्तर्गतम् मासेऽस्मिन् अष्टादश दिनांक पर्यन्तम् अनुवर्तिष्यमाणेन संयुक्ताभ्यासेनैतेन उभयोर्देशयो सैन्य बलानि पारस्परिकै सामरिक कौशलै लाभान्वितानि भविष्यन्ति चन्द्रयानम् भारतस्य चन्द्रावतरीतु विक्रमस्य आगामिनि सप्तमे दिनांके चन्द्रोपग्रहे अवतरणात् पूर्वम् इसरो इति भारतीयाऽन्तरिक्षाऽन्सन्धान संघटनेन तस्य द्वितीयम् निर्णायक च कक्षा निष्क्रमणम् अद्य प्रत्यूषे सफलतया निष्पादितम् चन्द्रे विक्रमस्य अवतरणाऽनन्तर ततोऽपसृत्य सक्रियता गत प्रज्ञानं चन्द्रोप ग्रहस्य दाक्षिणात्ये क्षेत्रे स्वीयां गवेषणा प्रक्रियां प्रारप्स्यते